निर्वाचनायोग दिल्ल्यां नातिचिरं निर्धारितेष् विधानसभा निर्वाचनेष् नियोज्यै पर्यवेक्षकै सार्धं गतदिवसे सार संक्षेपणी मन्त्रणामायोजितवान् ईरानीयो विदेशमन्त्री मोहम्मद जवाद ज़रीफ त्रि दिवसीय भारत यात्रायाम् अद्य नवदिल्लीं सम्प्राप्तोऽस्ति भगवतो भास्करस्य मकर राशौ संक्रमण प्रयुक्त मकर संक्रान्ति पर्व अद्य देशस्य विभिन्नेष् भागेष् सश्रद्ध सोल्लासं च परिपाल्यते रायसीनासंभाषणम आरब्धम प्रधानमन्त्री श्रीनरेन्द्र मोदी ब्रूते यद् विगत वर्षेभ्यो रायसीना संभाषणं महत्त्वाधायिनां वैश्विक रणनैतिक विषयाणां विमर्शाय तेजस्वि मञ्चत्वेन प्रकाशमायातमस्ति सद्य प्रकाशिते स्वीये ट्वीट् सन्देशे श्रीमोदी अवदत् यत् तत्रोपवेशने भारतस्य मित्र प्रवरै विश्व नेतृभि संमेलितुं संभाषितुं च स महान्तमवसरं लब्धवान्

अत्रेदं ध्यानास्प्दं विद्यते यद् आयोगेन नातिचिरमेव दिल्ल्यां विधानसभा निर्वाचनस्य कार्यक्रम समुद्घोषित आसीत् तदनुसारम् अत्र राज्ये आगामिन फेब्रअरी मासस्य अष्टमे दिनांके एकस्मिनेव चरणे मतदानानि आयोजयिष्यन्ते मतगणना च तदन्वर्तिनि एकादशे दिनांके भविष्यति

अमेरिका ईरानयोर्मध्ये साम्प्रतमनुवर्तमानाम् आततिम् आलक्ष्य ज़रीफस्य भारत यात्रा नितरां महत्त्वपूर्णा मन्यते श्रीज़रीफ अद्य प्रधानमन्त्रिणं श्रीनरेन्द्र मोदिनं मेलिष्यति रायसीना संभाषणस्याङ्गभूते विभिन्न राष्ट्राणां विदेश मन्त्रिणां सम्मेलने अद्य ज़रीफस्य व्याख्यानमप्येकं विनिर्धारित ं विद्यते

तमिलनाडौ पर्वेद पोंगल नाम्ना प्रसिद्ध्यति एतस्मिन् पृण्यमये पर्वणि श्रद्धालवो जना महति प्रत्यूषे गङ्गा कावेर्यादि नदी जलेष् पृण्यावगाहनम् आचरन्ति गृहतोरणं सज्जीक्वर्वन्ति ध्यान दान तपांसि च सविशेषम् अन्तिष्ठन्ति अवसरेऽस्मिन् विभिन्नै नेतृभि देशवासिनो वर्धापिता सन्ति क्रिकेट् गतरात्रौ मुम्बय्यामायोजिते प्रथमे एकदिवसीय क्रिकेट् इन्द्वे ऑस्ट्रेलिया दलेन भारत दशभि क्रीडकै पराजितम्